ग्वाहाट्याम् डिब्र्गढे च निषेधाज्ञा शिथिलता विहिता

प्रधानमन्त्रीकानप्रम् प्रधानमन्त्री नरेन्द्र मोदी अद्य कानप्रे गङ्गाया स्वच्छतामुद्दिश्य संघटिताया राष्ट्रिय गङ्गा परिषद प्रथमोपवेशनस्य आध्यक्ष्यं व्यदधात् नमामि गंगे इति परियोजनाया समीक्षाञ्च अकरोत् उपवेशनऽस्मिन् उत्तरप्रदेश मुख्यमन्त्री योगी आदित्यनाथ उत्तराखण्ड मुख्यमन्त्री त्रिवेन्द्र सिंह रावत बिहारोपमुख्यमन्त्री सुशील मोदी च उपस्थिता आसन् अत्रोवपेशने प्रकाश जावडेकरं गजेन्द्र सिंह शेखावतं डॉ हर्षवर्धनं हरदीप सिंह प्रीं च समेत्य नैके केन्द्रीय मन्त्रिण केन्द्र राज्य प्रशासनाधिकारिणश्च सहभागित्वम् आवहन् प्रधानमन्त्रिणा अनुष्ठितकार्याणि समीक्षितानि गड्गास्वच्छतायै नैके परामर्शाश्च प्रदत्ता झारखण्डम्प्रचार झारखण्डे विधानसभा निर्वाचनाना चतुर्थ चरणाय प्रचाराभियानानि अद्य सायं सम्पन्नता गतानि धनबाद देवघर गिरीडीह बोकारो इत्येतेष् चत्र्ष् जनपदेष् परिव्याप्तेष् पञ्चदश नैर्वाचनिक क्षेत्रेष् चरणेऽस्मिन् सोमवासरे मतदानानि भविष्यन्ति असमस्थिति असमे स्थिति शनै शनै सामान्या भवति गुवाहाट्याम् अद्य सप्त होरात्मिका डिब्र्गढे च षड् होरात्मिका निषेधाज्ञा शिथिलता विहिता ग्वाहाट्याम् आवश्यकवस्त्ना क्रयणाय सम्मर्द दृश्यते परञ्च ग्वाहाट्याम् अन्येष् च स्थलेष् शिक्षण संस्थानानि पिहितानि सन्ति

हिंस्रघटनास् संलिप्तान् जनान् विरुध्य कठोर पदक्षेपा ग्रहीष्यन्ते इत्येतदपि तया भणितम् तत्र सम्प्रति संसदा अभ्य्पगतं नागरिकता संशोधन विधेयकम् अभिलक्ष्य विरोध प्रदर्शनानि प्रवर्तन्ते

अद्य समापन सत्रे संबोधनक्रमे राष्ट्रपतिना रामनाथ कोविन्देन उक्तं यत् भारतं चिरस्थायि विकासम् आलक्ष्य निर्धनतोन्मुलक मध्यमायार्थ व्यवस्था प्रकत्पनाय प्रयासरतम् अस्ति तेनोक्तं यत् प्रत्येकमपि संस्थानं देशस्य सामाजिकार्थिक लक्ष्यपूर्तों महत्वपूर्णां भूमिकां निर्वक्ष्यति

प्रशासनेन सम्प्रति राष्ट्रिय वैद्य्तक मार्गीयश्ल्कादान प्रणाली प्रारब्धास्ति अनया प्रणाल्या समयेन्धनयो रक्षा भविष्यति अपि च गमनागमन व्यवस्थापि उत्तमा भविष्यति फास्टैग् युतानि वाहनानि मार्गीयश्ल्कादान स्थानकेष् अवरुद्धानि न भविष्यन्ति